भारतीय बैडमिंटन क्रीडक प्रियांश् राजावत ईसा टाउन नगरे बहरीन अन्ताराष्ट्रीय शंखलायां पुरुषैकल स्पर्धाम् विजितवान् राष्ट्रपति नीदरलैण्डम् राष्ट्रपति रामनाथ कोविन्द प्रावोचत् यत् आर्थिक सहयोग भारत नीदरलैण्डयो द्विपक्षीय सम्बन्धानां मूलस्तम्भो विद्यते नीदरलैण्डस्य राज्ञ विलियम अलैक्जेन्डरस्य तस्य भार्याया सम्माने च आयोजिते समारोहे श्री कोविन्देन प्रोक्तं यत् भारतीय समवायै नीदरलैण्डे निवेश क्षेत्रे महत्त्वपूर्णा भूमिका निर्व्यूढा निगदितं च यत् नीदरलैण्डसमवायै कृषिक्षेत्रे जल प्रबन्धने पोतपत्तन विकासे नागर योजनायाम् अवशिष्ट प्रबन्धने च वैश्विकप्रतिष्ठा अधिगतास्ति अमुना नीदरलैण्ड समवाया भारते सहयोगाय समाकारिता जम्मू जम्मू कश्मीरस्य गांदरबल जनपदे स्रक्षाबलेन पाकिस्तान समर्थितस्य हिजबुल मुजाहिद्दीन आतङ्किगुल्मस्य आतंकिनौ निगडितौ आरक्षिप्रवक्तानुसारेण विश्वसनीय सूचनाया अनन्तरम् एव आरक्षिबलानि सैन्यबलै सह मिलित्वा चांदी खटाना वजिदखटाना आतड्किद्वयस्य निगडनं कृतवन्त

आगरा उत्तर प्रदेशे प्रत्येकम् आगरा लखनऊ राजमार्ग परिवहन कर केन्द्रानन्तरं दिसम्बरमासस्य प्रथमदिनांकत फास्टेग सेवा उपलब्धा भविष्यति

राज्यप्रशासनं भारतीय राष्ट्रीय राजमार्ग प्राधिकरणेन सह एकस्मिन् सहमति पत्रे हस्ताक्षरम् अकरोत् अस्यान्तर्गतं प्राधिकरणं राज्ये डिजिटल कलेक्शन विंडो विस्य उद्घाटन करिष्यति

आतङ्करोधिबल प्रम्खाणाम् उपवेशनं सम्बोधयता प्रोक्तं यत् अनेन गुल्मेन झारखण्ड बिहार महाराष्ट् कर्णाटक राज्येभ्य प्रयासा विधीयन्ते राष्ट्रियान्वीक्षणाभिकरणेन सम्बद्धराज्यै सह सपादेकशतं गतिविधय सहकृता

गतदिने नवदिल्लाम् अन्तर्जालसम्बद्धकार्यक्रमस्योद्वाटनसत्रे तयोक्तं यत् राजनीतौ अन्तर्जालनीतौ च परस्पर सम्पात महत्त्वपूर्णो विद्यते निगदितं च यत् अन्तर्जालाधारितगतविधय सीमरहिता भवन्ति अत सुरक्षायै परस्पर सहयोगस्यावश्यकता भवति

अवधेयम यत् नियमानुसारेण बुकर पुरस्कार संयुक्तरूपेण नैव प्रदास्यते परं निर्णायक मण्डलेन पञ्च होरात्मक विचारानन्तरं नियमेष् शैथिल्यं प्रदाय निर्णय स्वीकृत मूलतो भारतीयस्य उपन्यासकारस्य सलमान रुश्दी व्यितस्य क्यूहोट्टो व्याख्यं पुस्तकमपि षड्ष् नामाङ्कित पुस्तकेष् अन्यतमम् अवर्तत्